गृहमन्त्रिणा अमितशाहेन अद्य मणिपुरस्य राजधान्याम् इम्फालनगर्यां सप्त विकास परियोजनानाम् आधारशिला स्थापिता तिस्र विकास परियोजना च समुद्धाटिता कोविड नवदश संक्रमणात् स्वास्थ्य लाभ मिति समेध्य पंचनवति दशमलव अष्ट द्वि प्रतिशन्मिता संकृत्ता

भवन्तोऽपि अस्माभि सह सुरक्षाया उपायत्रयस्य सङ्कल्पं स्वीकुर्वन्तु मुखावरकं सन्धारयन्तु सामाजिकदौर्यं परिपालयन्तु पाणिपादं च यथासमयं प्रक्षालयन्तु

अद्य प्रसारिते स्वीये मन की बात इति कार्यक्रमे प्रधानमन्त्री उक्त वक्तव्यं प्राकाशयत् श्रीमता मोदिना अभिनव बर्र्जी यो हि दिल्यां वसति इत्येतस्य अन्भव चर्चित प्रोक्तं च यत् अभिनव बनर्जी अब्रवीत् यत् उपभोक्तार भारते निर्मितानि वस्तूनि क्रेत्म् इच्छन्ति आपणिकाश्च तेषाम् अनुरोधम् अनुपालयन्ति प्रधानमन्त्री न्यगादीत् भारते अभिनवं परिवर्तनं दृष्टिपथम् आयाति

देशवासिन भारतस्य उत्पादनानि समीहन्ते अत देशस्था जना आदिवसं प्रयोक्ष्यमाणानां वस्तुनां सुचे निर्माणं कुर्वन्तु अनंतरम त्रिषां वस्तुनां भारते वि निर्माण प्रक्रियां समारभन्त् अत्रांतरे अमुना वस्त् निर्मातार उद्योगिन च विनिर्दिष्टा यत् वश्विक स्तरानग्गणं दर्शिकं निर्माणं भवेत् इति सुनिश्चितं कुर्वन्त् अत्रावसरे प्रधानमन्त्रिणा देशे विधीयमाना नक्कीउपक्रमा उपवर्णिता प्रोक्त च उत्साह वचनबद्धता इति द्वयमपि अनुसृत्य वयं निर्धारितं लक्ष्यं प्राप्तुं शक्नुम न हि सन्ति युवभ्य ज्ञानि तावत् दुष्कराणि समाह्वानानि

ििदतिरच्च श्रीमोदी सविशेष अवोचत् यत् तदीय प्रशासनं कश्मीर निर्मितं केसरं वश्मिक स्तरे समुन्नेत् विद्यते यत्नरतम् उपक्रमोऽयं आत्मनिर्भर भारतस्य निर्माणेऽपि सहायक सेत्स्यति गृहमन्त्री मणिपुरम् गृहमन्त्रिणा अमितशाहेन अद्य मणिपुरस्य राजधान्याम् इम्फालनगर्यां सप्त विकास परियोजनानाम् आधारशिला स्थापिता तिम्र विकास परियोजना च समुद्घाटिता अत्रावसरे गृहमन्त्री प्रावोचत् यत् मणिप्रस्य युवान सूचना प्रौद्योगिक्यां दक्षा विद्यन्ते प्रधानमन्त्री नरेन्द्रमोदी अपि मणिपुरस्य यूनां दक्षतां जानाति सममेवोक्तं यत् भाजपादलस्य कार्यकाले वर्षत्रये बे मणिपुरे अभूतपूर्वविकासोऽजायत् शान्तिश्च प्रवर्तिता गृहमन्त्रिणा विपक्षिण अभिलक्ष्य निगदित यत् इत प्राक् प्रशासना प्र्वोत्तर क्षेत्रम् उपेक्षितं परं प्रधानमन्त्रिणा नरेन्द्रमोदिना स्वयमेव अत्रत्या चत्वारिशदधिका यात्रा विहिता अत्रावसरे पूर्वोत्तरक्षेत्र विकास राज्य मन्त्री डॉ जितेन्द्रसिंह आवोचत् यत् मणिप्रे भाजपा शासनानन्तरं राज्ये अशान्ते स्थिति समाप्तिं गता

असौ कतरस्य उपप्रधानमन्त्रिणा विदेश मन्त्रिणा च साकं सम्भाषणं करिष्यति विदेशमन्त्रिरुपेण पदग्रहणानन्तरं जयशंकरस्य प्रथमेऽयं कतरयात्रा भविष्यति यात्रावधौ विदेशमन्त्री द्विपक्षीयविषयान समेत्य क्षेत्रीयान्ताराष्टिय विषयेष् विचार विमर्शं करिष्यति भवन्त भवत्यश्च संस्कृतवार्ताया संस्करणमिदं इदानीम आकाशवाणीत श्रण्वन्ति

विविध वस्तुपरिपूरिते अस्मिन् याने शाकानां पुष्पाणां फलानां च पृथक् पृथक् रेल स्थात्रेष् अपरिमित भारारोपण सौविध्यं भविष्यति प्रशासनेन शाकान्नानां परिवहने प्रतिशतं पञ्चाशतमितम् अर्थसाहाय्यं प्रदत्तमस्ति अवसरेऽस्मिन् कृषिमन्त्री नरेन्द्रसिंह तोमर रेलमन्त्री पीयूषगोयल च उपस्थास्यत

आरक्षिमहानिदेशक दिलबागसिंह प्रावोचत् यत् आतंकिन अल बदर गुल्म सम्बद्धा विद्यन्ते स्रोतोभि प्राप्यसूचनानुसारेण आरक्षिभि तत्र अन्वेषणाभियानं प्रारब्धमासीत् ईराने दुर्घटना ईरानस्य तेहरान नगरे हिमपात कारणेन दश पवर्तारोहिण कालग्रासी भूता तत्रत्य वार्ताभिकरणानामनुसारेण किस्या नौकाया चालकदलस्य सप्त सदस्या चक्रवातानन्तरं विलुप्ता सूच्यन्ते क्रिकेट ऑस्ट्रेलिया देशस्य मेलबर्न नगरे अनुवर्त मानायां भारत ऑस्ट्रेलिया दलयो द्वितीय क्रिकेटनिकषस्पर्धायां द्वितीये दिने क्रिडावसानं यावत् भारतेन पञ्च क्रीडकानां हानौ सप्तसप्तत्यक्तरद्विशतं धावनाङ्का समर्जिता

भारताय अजिङ्क्य रहाणे चत्रोत्तरक्रितम् अथ च रविन्द्र जडेजा चत्वार्रिशत् धावनाङ्कान् समर्ज्य क्रीडारतौ वर्तेते तृतीये दिने भारतं द्वयशीतिः धावानाङ्कानाम् अधिक्यं स्वीकृत्य अग्रे क्रीडिष्यति